अनेन उपभोक्त ऋणादानमपि अपचेष्यते

अवसरेऽस्मिन वायु सेना अध्यक्षेण एयर चीफ मार्शल राकेश कुमार सिंह भदौरिया वर्येणोंक्त यत् वायुसेना कस्यामपि स्थित्यां देशस्य रिपून् सम्मुखीकर्ती जेत्ं च सज्जीभूता वर्तते नवदिल्ल्यां वायुसेनाया वार्षिक वार्ताहर सम्मेलने तेनोदीरितं यत् प्रकरणेऽस्मिन् न्यायालयीय अन्वीक्षण विवरणं अधिगतम् फरवरी सप्तविंश्यां कश्मीर वायुसेनाया मी सप्तदश नामाख्यम् उदग्रयानं ध्वस्तीभूतं आसीत् यत्र षड् वायुसैन्य भटा मृत्युपगता आसन् रिजर्वबैंक परिमिति भारतीय रिजर्व बैंक इति वित्तकोषेण स्वीय रेपो परिमितौ पञ्चविंशति आधारांकानाम् अपचितिं कृत्वा प्रतिशतं दशमलवोत्तर चतुरधिक पञ्च त दशमलवोत्तर एक पञ्चाधिक पञ्चमिता विहितास्ति अनेने सहैव रिवर्स रेपो इति परिमितिश्चापि अल्पीकृत्य दशमलवोत्तर नवाधिक चतुर्मिता विहितास्ति अद्य मुम्बय्यां वित्तकोषस्य चतुर्थी द्वप्रिसिकीं नीतिम् उद्वोषयता बैकस्य गवर्नर इति अधिशासिना शक्तिकान्तेन इद सर्व प्रतिपादितम् रिजर्व बैंकस्य अधिशासिना एषमो वर्षस्य सकल गृहोत्पादस्य अनुमानं प्रतिशतं दशमलवोत्तर नवाधिक षण्मित त अपचीय दशमलवोत्तर एकाधिक षण्मितमेव विहितमस्ति आगामि वर्षाय इदं संशोध्य प्रतिशतं दशमलवोत्तर द्वयधिक सप्तमितं कृतमस्ति कोषस्य मौद्रिक नीति समित्या अर्थव्यव्स्थायां परिष्कारम् आपादयितुम् उदारनीति प्रवर्तनं निर्णीतमस्ति

रेपो परिमितौ अल्पता आनयनस्य उद्देश्य आवास बाहनादिभ्य ऋणादानानां परिमितावपि न्यूनतापादनमस्ति जम्मूकश्मीरपुष्पकृषि जम्मूकश्मीर प्रशासनेन जम्वां कश्मीर च पृष्पाणां कृष्यर्थं विशेष केन्द्रस्थापनं प्रस्तावितमस्ति राज्यपालस्य सम्मशदेन ख्र्शीद अहमद गनाई वर्येण श्रीनगरे प्रतिपादितं यत् एतदन्तर्गतं प्रसूनोत्पादका कृषका ग्णवत्ता पूर्णानि पृष्पाणि उत्पादयितुं प्रशिक्षयिष्यन्ते जम्मू कश्मीर एमआरडीए जम्मूकश्मीर प्रशासनेन महानगरीय क्षेत्र विकास प्राधिकरणान्तर्गतं श्रीनगरं जम्मू च युग्मनगर निर्मात् योजना विरचितास्ति

सर्वाधिक तीव्रगत्या रेलयानमिद यात्रिणां सौविध्यथं सर्वा सुविधा उपपादयिष्यति रेलयानमिदं भौमवासरं अतिरिच्य सप्ताहे सर्वेष् दिवसेष् प्रचलिष्यति विलम्ब स्थित्यां यात्रिभ्य अनुग्रह राशिं चापि प्रदास्यति

हज हज यात्रिणां कृते अक्तूबर दशम दिनांकात् अन्तर्जालीय प्रणालीत पञ्जीकरणं प्रारप्स्यते